महाराष्ट्रे महाविकास अघाडी मन्नित्रमण्डलस्य विस्तार राष्ट्रवादी कांग्रेस पार्टी नेता अजीत पवार उपमुख्यमन्त्री पदमलंकरिष्यति सतत् विकास लक्ष्य सूचकांक श्रेण्यां भारतदेश तृतीय स्थाने वर्तते उत्तर भारते भीषण शैत्य क्ज्झटिका कारणाच्च जनजीवनं प्रभावितं जायते

तेनादय एकस्मिन् ट्वीट् सन्देशे प्रोक्तं यत् अधिनियमेऽस्मिन् प्रतिवेशि देशेष् संपीडित शरणार्थिनां कृते नागरिकताया विषय उल्लेखित प्रधानमन्त्रिणा स्वीय ट्वीट् सन्देशे एकस्य सद्ग्रो दृश्यांकनमपि संयोजितम् अत्र अधिनियमस्य विभिन्ना पक्षा स्पष्टीभूता अमेरिका अमेरिकाया न्यूयॉर्के प्रवासी भारतीया नागरिकता संशोधन अधिनियमस्य समर्थनं कुर्वन्तः इदं भारत प्रशासनस्य ऐतिहासिकं पदं प्रोक्तम् हय टाइम्स स्कवायर स्थले सम्भूय भारतीय मूलस्य अमेरिकीय जनै स्फोरक पत्राणि गृहीत्वा मोदी प्रशासन नागरिकता संशोधन अधिनियमस्य समर्थने सघोषा उच्चारिता महाराष्टम् महाराष्ट्रे उदधव ठाकरे नेतृत्वयुतस्य महाविकास अघाड़ी प्रशासनस्य अदय मुम्बय्यां बहप्रतीक्षित प्रथम मन्त्रिमंडलीय विस्तार संजायते महाराष्ट्रस्य राज्यपालेन भगतसिंह कोशियारिणा मन्त्रिभ्य पद गोपनीयतायै शपथम् अङ्गीकारितम्

जावड़ेकर भारतदेशे विगत दवि वर्षेष् वक्षाणां वनानां च क्षेत्रं पञ्च सहस्र वर्ग किलोमीटरतः अधिकं विवर्धितम् नवदिल्ल्यामदय भारते वनानां स्थिति विवरणं नवदशोत्तर दवि सहस्रतमे वर्षे इत्यमुमं प्रकाशयन् पर्यावरण वन मन्त्रिणा प्रकाश जावड़ेकरेण उदीरितं यत् सप्तदशोत्तर द्विसहस्रतम वर्षात् आकलने देशस्य कार्बन स्टॉक दविचत्वारिंशद् कोटि षष्टि लक्षात्मक टन विवर्धित

इदं वर्धित्वा सप्तपञ्चाशत त षष्टि मित सम्प्राप्त

सीबीआई सीबीआई इति केन्द्रीयान्वेषणाभिकरणेन द्वयो प्रकरणयो प्रसृतान्वीक्षण प्रकरणे श्रीनगर जम्मू ग्रूग्राम नोएडायां त्रयोदश स्थानेष् सहसान्वीक्षणं विदधाति क्पवाडा बारामूला उधमप्र किश्तवाड शोपियां डोडा प्लवामाया तत्कालीन उपाय्क्त जनपद न्यायाधीशानां च परिसरेष् सहसान्वीक्षणानि संजायन्ते

जम्म कश्मीरं सैन्यभटै जम्मू कश्मीरे नियन्त्रण रेखाया पार्श्वे राजौरी जनपदे विस्फोटकं विफलीकृत्य विजयमधिगतम् ह्य सेनया केरी क्षेत्रे नियन्त्रण रेखाया निकटे विस्फोटकोऽयं सुरक्षिततया निष्क्रियं कृतम् सेनायाः उत्तरीय शाखायाः प्रमुखः लेफ्टिनेंट जनरल रणबीर सिंहेन कश्मीरोत्पयकायां स्रक्षास्थिति समीक्षिता